वार्ताः विशदीकृत्य कोविड अद्यतनम् सम्पूर्णदेशे अधुनापर्यन्तं त्रिनवतिलक्षाधिक त्रिकोटिजनेभ्य कोरोणाया सूच्यौषधानि प्रदत्तानि केन्द्रियस्वास्थ्यमन्त्रालयेन कथितं यत् विगत चत्र्विंशतिहोरास् द्विशताधिकद्वाविंशतिलक्षाधिकजना अनेन टीकाकरणकार्यक्रमेण लाभान्विता सन्ति अनेनसह राष्ट्रे सक्रिय प्रकरणानाम् अपि संख्या द्रतगत्या वर्धमाना अस्ति यत्र महाराष्ट्र पंजाब कर्णाटक ग्जरातेन सह छत्तीसगढप्रदेशानां नामानि उपरि सन्ति विगत चत्र्विंशतिहोरास् प्रायश चत्वारिंशत् सहस्राणि न्तनप्रकरणानि प्टिं गतानि सम्प्रति यावत् संक्रमितानां संख्या पंचदशलक्षाधिक एककोटिमिता जाता अस्मिन् एव काले चत्पंचाशत् जना च अनेन व्याधिना कालकवलिता जाता आहत्य मृतकानां संख्या वरिवर्ध्य एकोनषष्ट्यूतरक्लिक्षम् इति जाता कोविड महामारीम् अभिलक्ष्य प्रशासनेन वास्त्कलाया स्नातकपाठ्यक्रमेष् प्रवेशाय निर्धारित पात्रतानियमा न्यूनीकृता अद्य लोकसभायां एकस्य प्रकप्रश्नस्य उत्तरे स्वास्थ्यमन्त्रिणा डॉ हर्षवर्धनेन उक्तं यत् कोविड महामार्ये दीयमानानि सूच्यौषधानि पूर्णत सुरक्षितानि सन्ति सूच्यौषधस्य क्षमतायामपि संदेह न कर्तव्य तेन अग्रे निगदितं यत् कठोरतमा विज्ञानिकपरीक्षण ि सह राष्ट्रिया अन्तराराष्ट्रिया विशेषज्ञ निरीक्षणानन्तरमेव इमानि सूच्यौषधानि दीयमानानि सन्ति तेन सर्वे जना सूच्यौषधग्रहणाय निवेदिता

सहब स्व स्व क्षेत्रेष् अपि स्रक्षा उपायम् अभिलक्ष्य ध्यान दद्य्

मूडीज़ इति संस्थाद्वारा ह्य प्रकाशिते अनुमानात्मके परिपत्रे भारतदेश निकटभविष्ये संभावनाभि पूरित अस्ति इति उल्लिखितवान् कोरोणामहामारीम् आलक्ष्य जीडीपी इत्यस्य अष्टप्रतिशतात्मकम् अधोगमनस्य अनुमानमासीत् परं न तथा अभवत् सहक्व आकाशवाण्या वार्ताहरं संबोधयता प्रसिद्धेन अर्थशस्त्रिणा नवीनग्प्तेन निगदितं यत् भारतीया अर्थव्यवस्था सुद्रढतमाया स्थितौ अस्ति

अम्ना एतद् वक्तव्यं लोकसभायां प्रश्नावसरे प्रकप्रश्नानाम् उत्तररूपेण प्रतिपादितम् अत्रद्व जावडेकर उक्तवान् यत् जलवाय परिवर्तनस्य कार्ययोजना अपि च अन्योपायानां क्रियान्वयनकारणेन पंचोत्तरद्विसहस्रतम् वर्षात् षोडषोत्तरद्विसहस्रवर्ष यावत् कार्बन उत्सर्जनस्य सघनता जीडीपी इत्यस्य अन्पातक्रमे चत्र्विंशति प्रतिशतम् न्यूनतम् अभवत् सर्वकारेण लोकसभायां संसूचितं यत् भौगोलिकदृष्ट्या भारतस्य वनक्षेत्राणि वरिवर्ध्य चतुर्विंशतिदशमलव पंचषड् इति जातम्

इदमालक्ष्य सर्वेष् विधानसभा निर्वाचनक्षेत्रेष् राजनत्क्रिदलानां प्रचाराभियानंद्रततरं जायमानम् अस्ति ध्यातव्यमस्ति यत् असमराज्ये प्रथमचरणे सप्तचत्वारिंशत् विधानसभा क्षेत्रेभ्य अपि च पश्चिमबंगालराज्ये त्रिंशत्विधानसभाक्षेत्रेभ्य सप्तविंशति दिनांके मतदानं भविष्यति

अन्तिमचरणाय अप्रस्त्रिमासस्य षष्ठे दिनांके असमराज्यस्य चत्वारिंशत् पश्चिमबंगालस्य च एकत्रिंशत् आसनेष् मतदान स्निश्चितम् अस्ति विशेषतया केरलप्रान्ते न्य्रीचनिक उष्णता उर्ध्वं गच्छन्ती अस्ति नामांकनप्रणस्य अन्तिमे दिवसे अद्य सहस्राधिकजन नामांकन पत्राणि पूरितानि

राज्ये सत्तासीनानि एलडीएफ इतिवामपंथीयदलानि अपि प्रचारस्य द्वितीय ं चरणं प्रारम्भम् अक्र्वन् अन्य दलीयाश्च नेतार प्रतिद्वारं गत्वा प्रचारं क्वन्त सन्ति नित्यानन्द सीआरपीएफ गृहराज्यमन्त्रिणा नित्यानन्दरायेन उक्तं यत् केन्द्रिय रिजर्व पुलिस बलं नक्सलप्रभावितक्षेत्रेषु सर्वकारीयनीतिनां क्रियान्वयने कृतसंकल्पं सत् कार्यं करोति अम्ना अद्य केन्द्रिय रिजर्व प्लिस बलस्य दव्यशीतितमस्य स्थापनादिवसस्य उपलक्ष्ये आयोजितकार्यक्रमे एतदपि उक्तं यत् स्रक्षा बलेन झारखंड छत्तीसगढयो नक्सलवाद आशंकितक्षेत्रेषु शान्ते विकासस्य च मार्ग प्रस्तीकृत अस्ति